प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रबुद्ध भारत पत्रिकाया सपादैकशततम वर्षपूर्ति समारोह सम्बोधित प्रधानमन्त्री अवोचत् यत् स्वामिना विवेकानन्देन भारतं सांस्कृतिक चेतना रुपेण दृष्टम् या हि साम्प्रतं जीवनं सन्धार्य श्वसिति प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वकीय मन की बात इति कार्यक्रमे अन्यदेशापेक्षया अत्यधिकं तीव्रगत्या प्रचाल्यमानं कोविड नवदश संक्रमण प्रतिरोधि सूच्यौषधाभियानं संगर्वं प्रशंसितम् केन्द्रीय कृषिमन्त्री नोन्द्र सिंह तोमर पुन प्रोक्तवान् यत् नवीनकृषि अधिनियमा वर्तमान न्यूनतम समर्थन मूल्य व्यवस्थां मण्डीव्यवस्थां च न प्रभावयन्ति देशे कोरोना संक्रमितानां स्वस्थताप्रतिशतता समेध्य नवनव दशमलवोत्तर षण्णवतिपरमिता संकृत्ता कोविड् संचेतना सन्देश प्रियाः श्रोतारः कोरोणा महामारीं विरुध्य देश ऐक्य भावनया युध्यते भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड्कल्प स्वीक्वन्त् मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपाद च यथासमयं प्रक्षालयन्तु बजट् केन्द्रीय वित्तमन्त्री निर्मला सीतारमण अद्य केन्द्रीय आय व्यय पत्रकं एकादशवादने लोकसभायां प्रस्तोष्यति प्रधानमन्त्रिणा श्क्रवासरे विश्वास प्रकटित आसीत् यत् इद आयव्यय पत्रकं गत दशस् मासेष् उद्घोषितेष् संक्लेष् एकभागरुपेण दृश्यते आर्थिक सर्वेक्षणानुसारं सकल गार्हिकोत्पादमिति भावि वित्त वर्षाय एकादश प्रतिशतमितं अनुमतास्ति पीएम प्रब्द्ध भारत प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रबुद्ध भारत पत्रिकाया सपादैकशततम वर्षपूर्ति समारोह सम्बोधित प्रधानमन्त्री अवोचत् यत् स्वामिना विवेकानन्देन भारतं सांस्कृतिक चेतना रुपेण दृष्टम् या हि साम्प्रतं जीवनं सन्धार्य श्वसिति

मन की बात प्रधानमन्त्रिणा नरेन्द्रमोदिना अन्यदेशापेक्षया अत्यधिक तीव्रगत्या प्रचाल्यमानं कोविड नवदश संक्रमण प्रतिरोधि सुच्यौषधाभियानं सगर्वं प्रशंसितम् तेन सबलं व्याहतं यत् कोविड नवदश संक्रमणं सम्म्खीकत्ं प्रयासै सुच्यौषध प्रयोगाभियानेन च अधिविश्वं अप्रतिमोदाहरणं सम्प्रस्तृतम्

भारतीय उच्चायोग अनुसारि भारतीय वीजा आवेदन केन्द्राणि राजशाहयां चिटोप्रामे रंगपूरे बोग्रायां ठक्करप्रामे नौखल्यां कौमिल्यां च अध्ना उद्घटितानि स्थास्यन्ति तोमर केन्द्रीय कृषिमन्त्री नरेन्द्र सिंह तोमर प्न प्रोक्तवान् यत् नवीनकृषि अधिनियमा वर्तमान न्यूनतम समर्थन मूल्य व्यवस्थां मण्डीव्यवस्थां च न प्रभावयन्ति अपित नृतन व्यवस्थान्तर्गतं मण्डी व्यवस्था सरला मल्यप्रभाविनी सहयोग सम्पन्ना च भविष्यति

स्वास्थ्य मंत्रालयानुसारं त्रयोविंशतिसहस्राधिक चतुर् लक्षोत्तर एक कोटि जना प्रागेव चिकित्सालयेभ्यो विमुक्ता तत्रैव देशे संक्रमितानाम् सक्रिया संख्या प्राय अष्टषष्टि सहस्रोत्तर एकलक्ष मिता वर्तते